पञ्जाबराज्ये न्यूनतम समर्थन मूल्यम् अतिकाम्य शासकीयेतर समवायै कार्पास क्रयणं विधीयते देशस्य उदीच्यभागे शीतप्रकोप प्रवर्धतेतराम् उत्तरभारते श्व प्रात काल तुषाराच्छादित अनुमीयते ऑस्ट्रेलिया भारतं चान्तरा अनुवर्तमानायां तृतीयनिकषस्पर्धायाम् भारतं सप्तोत्तर चतृश्शतं धावनाकांनां लक्ष्यं अनुसरति

प्रधानमन्त्रिण कार्यालयेन सूचनेयं प्रदत्ता सहैव निगदितं यत् अस्यां वार्तायां कोविड नवदश सम्बद्ध स्थितौ चर्चा भविष्यति ध्यातव्यमस्ति यत् भारते सूच्यौषध अभियानं मासस्यास्य षोडश दिनांकत प्रारम्भं भविष्यति इति देशस्य औषध महानियन्त्रकेन भारते निर्मितं कोवि शील्ड एवञ्च को वैक्सीन इत्येतयो आपात्कालिकप्रयोगाय अनुमति निर्देष्टा अस्ति

उपवेशने राज्यानां केन्द्रशासित प्रदेशानाञ्च शीर्षाधिकारिण सहभागं अकुर्वन् को विन इति प्रौद्योगिकीय तन्त्र समारप्यमाणे सूच्यौषध प्रयोगाभ्यासे महत्वपूर्णभ्मिकां विधत्ते

प्रधानमन्त्रिण आध्यक्ष्ये ह्य राज्यानां केन्द्रशासितप्रदेशानाब्व स्थितौ एका चर्चा विहितासीत् तस्मिन् उपवेशने प्रधानमन्त्रिणा कोविड प्रबन्धनस्य विस्तृता व्यापिनी समीक्षा कृतासीत् अपि च प्रधानमन्त्री सूच्यौषध वितरण प्रबन्धन प्रणाली कोविन इति विषये संसूचितः अद्यावधि नवसप्तत्यधिकानां लाभार्थिनां पंजीकरणं अभूत् पंजाब एमएसपी पञ्जाबराज्ये शासकीयेतर समवायै प्रशासनद्वारा विनिर्धारित न्यूनतम समर्थन मूल्यं अतिक्राम्य कार्पास क्रयणं समनुष्ठीयते एतत्क्रयणाय अधिकृत संस्थया भारतीय कपास निगम इत्यनया पञ्चविंशत्यधिक सप्तशतोत्तर पञ्च सहस्न रुप्यकमूल्यै प्रतिशतं किलोप्राममितं कार्पास क्रयणं विधीयते किन्तू शासनेतर समवायै नवशताधिक पञ्चसहस्रुप्यकमूत्यै कार्पास क्रयणं परिपाल्यते एतत्सम्बद्धा राज्यस्य कृषका स्वीयोत्पादानां अत्यधिकमात्रायां शासकीयेतर समवायै साकं व्यवहार विनिमयं कुर्वन्ति

आगामि चत्वारि पञ्च दिवसेषु तापमानम् अपचीयते इति सम्भाव्यते ऋतुविज्ञानविभागेन न्यगादि यत् उत्तर भारतस्य अधिकांश स्थलेषु तापमानं त्रिअंशत पञ्चांशमध्ये भविष्यति उत्तराखण्ड पञ्जाब हरियाणा उत्तर राजस्थानेष् शीतप्रक्रोप यथावस्थं सम्भाव्यते पश्चिमीय विक्षोभकारणेन जम्मूकाश्मीर लद्दाख गिलगित मुजफ्फराबाद स्थानेष् हिमवृष्टि जाता पञ्जाब हरियाणा चण्डीगढ़ दिल्ली उत्तरप्रदेशेष् श्व प्रात काले तुषारो अनुमीयते

विगते अहोरात्रे एकाधिकद्विशतं रोगिण कालकवलिता अभूवन् एवञ्च भूयोऽपि नवदशसहम्रां जना स्वस्थीभूता सहैव संक्रमितानां संख्या साम्प्रतं एकं चत्वारि दशमलवोत्तर द्विप्रतिशतं यावत् वर्तते भारतीय आयुर्विज्ञान अनुसन्धान परिषदा प्रतिपादितं यत् ह्य प्रायश सार्ध अष्टलक्षमितानां रोगिणां परीक्षणानि समनुष्ठितानि

यूनां आदर्श स्वामि विवेकानन्दस्य जन्म जयन्त्यवसरे अस्य महोत्सवस्य आयोजनं वर्षेडस्मिन् अन्तर्जालीय तन्त्रमाध्यमेन विधास्यते कार्यक्रमेऽस्मिन् युवान स्वीय प्रतिभाया प्रदर्शनं करिष्यन्ति अनेकासु प्रतिस्पर्धासु च सम्मिलिता भविष्यन्ति आसु सांस्कृतिकस्पर्धा चित्र प्रदर्शनानि बौद्धिक विचारविमर्शा य्व कलाकार शिबिराणि संगोष्टय साहसिक कार्यक्रमा च अन्यतमा सन्ति अन्ते च प्रस्कारा अपि दीयन्ते आकाशवाण्या विशेष साक्षात्कारे केन्द्रीय खेलमन्त्रिणा किरण रिजिज्वर्येण प्रोदित यत् प्रधानमन्त्री कार्यक्रमस्यास्य उद्घाटनं करिष्यन्ति अपि च संसद केन्द्रियकक्षे कार्यक्रमस्य समापनं भविष्यति इति एवियन इन्फ्लूएंजा केन्द्रीय मत्स्य पश्पालन दुग्धोत्पाद विभागेन एविएन् इन्फ्लूएंजा इति संक्रमणरोगं निध्याय परामर्शोंडस्ति प्रख्यापित येन हि जना सुरक्षा परिपालयेय् साम्प्रतं यावत् केरल राजस्थान मध्यप्रदेश हिमाचल प्रदेश हरियाणा ग्जरात उत्तरप्रदेशेष् राज्येष् एतत् संक्रमण सम्मुखीकर्त् केन्द्रीय विशेषज्ञानां दलं स्थिति निरीक्षते केन्द्रीय मत्स्य पश्पालन द्ग्धोत्पाद मन्त्रालयेन एतद् विषये जागरुकतां वर्धयित् जना प्रार्थिता सन्ति ऑस्ट्रखिया भारत क्रिकटि ऑस्ट्रेलिया भारतं चान्तरा अनुवर्तमानाया तृतीयनिकषस्पर्धाया चतुर्थे दिवसे ऑस्ट्रेलिया दलेन भारताय सप्तोत्तर चत्शतं धावनाकांनां लक्ष्यं अस्ति विनिर्धारितम् स्वीये द्वितीये पर्याये ऑस्ट्रेलिया दलेन षड् क्रीडकानां हानिपुरस्सरं द्वादशाधिक त्रिशतं धावनांका समधिगता अपि च द्वितीय पर्याय उद्घोषणापूर्वकं स्थगित भारतं सप्तोत्तरं चतुशत धावनाकांनां लक्ष्यं अनुसरता चतुर्थ दिवसावसानं यावत् रोहित शुभमन् इत्येतयो क्रीडकयो हानिपुरस्सरं अष्टनवति धावनांकान् समार्जयत् साम्प्रतं दलनायक राहाणे अपि च चेतेश्वर प्जारा पयार्थं वर्धयन्तौ स्त भारतस्य आरम्भकर्तारौ रोहित श्भमन् इत्येतौ सम्भूय एकसप्तति धावनाकांन् समर्जितवन्तौ इत ऑस्ट्रेलिया दलाय स्टीव स्मिथ् इत्यसौ कैमरून ग्रीन इत्यसौ च धावनाकांनां अर्धशतकं समर्जितवन्तौ भारतीय पक्षत नवदीप सैनी रविचन्द्रन अश्विन् इत्येताभ्यां द्वौ द्वौ कीडकौ क्रीडातो बहिष्कृतौ

स्पर्धेयं निर्णायिका भवित्म् अर्हति इत्यनुमीयते श्व स्पर्धामिमा जेतूं भारतं स्वीययात्रां प्रारप्स्यते